दिल्ली हिंसाचार घटनामवलम्ब्य विपक्षिदलै कृत कोलाहल कारणात् द्वयो सदनयो कार्यजातम् पुनरद्य स्थगितम् विदेशमन्त्रालयेनाद्य नागरिकता संशोधनाधिनियम प्रकरणम् पूर्णतया भारतस्यान्तरिक प्रकरणत्वेनोपवर्णितम्

अपि च सप्तषष्टि देशेषु कोरोना विषाणु संक्रमणेन दुष्प्रभावितानां संख्या नवाशीति सहम्राधिका प्रख्यापिता विश्व स्वास्थ्य संघनेना प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना भाजपेतिदलस्य सांसदा देशस्योत्कर्षाय समाजे शान्ति सौहार्द एकता भावं सुनिश्चेत् प्रोदीरिता प्रधानमन्त्री अद्य नवदिल्यां समनुष्ठिते भाजपा संसदीय दलोपवेशने अभिभाषते स्म मन्त्रणानन्तरं वार्ताभिकरणै साधं संवादक्रमे संसदीय कार्यमन्त्री प्रहलाद जोशी न्यागदीद यत् दलीय सांसदा राष्ट्रहितं सर्वोपरि स्थापयित् अध्यर्थिता प्रधानमन्त्रिणा सदन स्थगनम् दिल्ली हिंसाचार घटनामवलम्ब्य विपक्षिदलै अनारतं कृतात् कोलाहल कारणात् लोकसभा राज्यसभेति द्वयो सदनयो कार्यजातम् प्नरद्य द्वितीये दिवसेऽपि स्थगितम् मध्यावकाशानन्तर लोकसभा कार्यजातस्य आरब्धे सति अध्यक्षेण ओम् बिरला वर्येण विपक्षिदलानि समाश्वासितानि यत् प्रशासनं उक्तप्रकरणं होली पर्वानन्तरं परिचर्चिष्यति परं लोकसभाध्यक्षस्य अध्यर्थना नैव मन्यमानै विपक्षिदलसदस्यै प्रकरणमिदम् अद्यैव परिचर्चित् प्रोदितम् कोलाहलं चाचरितम् विदेशमंत्रालय विदेशमन्त्रालयेनाद्य नागरिकता संशोधनाधिनियम प्रकरणम् पूर्णतया भारतस्यान्तरिक प्रकरणत्वेनोपवर्णितम् प्रोक्तं च अधिनियमोऽवं विधि विरचनस्य भारतीय संसद सार्वभौमिकाधिकारेण सम्बद्वोऽस्ति विदेशमन्त्रालयस्य प्रवक्त्रा रवीशकुमारेण कथितं यत् देशस्य सार्वभौमिकता सम्बद्वेष् प्रकरणेष् न काचिदन्या संस्था हस्तक्षेपार्थं अन्मति प्रदास्यते ध्येयमस्ति यत् नागरिकता संशोधनाधिनियम प्रकरणे उच्चतमन्यायालये मानवाधिकारेभ्य संयुक्त राष्ट्र उच्चायुक्तस्य हस्तक्षेप परा याचिका पञ्जीकरणान्तरं विदेशमन्त्रालयस्य वक्तव्यमिदं समागतम् दिल्ली निगडनम् गतमासस्य चतर्विंशे दिनांके उत्तर पर्वीय नवदिल्ल्यां हिंसाचारावधौ आरक्षिण लक्ष्यीकृत्य गोलिका प्रहर्ता दिल्यारक्षिबलेन निगडित शाहरूख नाम्नाभिज्ञातोयं दोषी दिल्यारक्षि अपराधा शाखया उत्तरप्रदेशात् निगडित

यद्यपि पञ्चविंशत्युत्तर शतं संक्रमणेन प्रभावितानि नूतन प्रकरणानि तत्र पुष्टिकृतानि इदमित्थम् कोरोना विषाणुना अखिलेऽपि विश्वे अधुनावधि प्राय त्रि सहस्राधिका जना मृता जाता तत्रैव सप्तषष्टि देशेषु उक्त संक्रमणेन द्ष्प्रभावितानां संख्या नवाशीति सहम्राधिका प्रख्यापिता विश्व स्वास्थ्य संघनेन अपरत्र गतदिने नवदिल्यां वार्ताभिकरणै समं सम्भाषणेन स्वास्थ्यमन्त्रिणा डॉक्टर हर्षवर्धन वर्येण संसूचितं यत् देशे संक्रमणस्य दृष्प्रभावं सम्मुखीकर्त् सर्वथा सन्नद्वमस्ति प्रशासनम्

तेनेदमपि प्रतिपादितं यत् देशे संक्रमणेन प्रभावितेष् पञ्च प्रकरणेष् त्रय सर्वथा स्वस्था सन्ति अन्यं च प्रकरणद्वयं निरीक्षणाधीनं वर्तते संक्रमणमिदं सम्मुखीकर्त् तदीयप्रशासनेन विहितेष् प्रयासेष् प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वयं दृष्टि सन्धार्यते